विधेयकमिंद पूर्वत एव तथोक्त स्मारके प्रवर्तितस्य एकपंचा शद्त्तरैकोनविंशतितम संख्याकस्य अनुच्छेदस्य स्थानं परावर्तयिष्यति नूतन विधेयकानूगुणं जलियांवाला बाग स्मारकस्य संस्थापक सदस्ये परिवर्तनं भविष्यति सम्प्रति स्मारकस्य संस्थापक सदस्यनेता राज्यसभायां प्रथमस्थानभाक्विपक्षिदलाध्यक्ष भवेत्

लोकसभाया जेएनयू छात्र प्रदर्शन प्रकरणे कांप्रेसदलेन कोलाहल प्रदर्शित तत्रैव राज्यसभायामपि जेएनयू प्रदर्शनं अथ च जम्मूकश्मीर स्थिति विषयमवलम्ब्य विपक्षिदलसदस्यै कोलाहल समाचरित राष्ट्रपति राष्ट्रपति रामनाथकोविन्दो ब्रूते यत् व्यापार सरलीकरण सूचकांके भारतस्य स्थितिं सुदृढयितुं प्रशासनेन अनवरतं महत्वपूर्णा पदक्षेपाविहिता सम्प्रति प्रशासनं नागरिकाणां जीवनशैलीं सामान्यीकर्तू प्रयत्नरतमस्ति

एतत्कृते अवेदनपत्र प्रप्रणादि प्रक्रियार्थं पदक्षेपा पूर्वमेव विहिता असौ गतदिने गान्दरबले समायोजिते एकस्मिन् सैन्यकार्यक्रमे सम्भाषते स्म जम्मूकश्मीरम् राष्ट्रिय स्वास्थ्य अभियानं जम्मूकश्मीरम् स्वास्थ्य सौविध्य सेवा प्रदाने अभिनव योगदानं विधत्ते

निखिलेऽपि देशे आगामि वर्षस्य मार्चमासं यावत् चत्वारिशत् सहस्राणि स्वास्थ्यकेन्द्राणि संचालयिष्यन्ते क्रि समुद्रोषणा साम्प्रतं देशस्य विविध भागेष् सप्त विंशति सहस्राणि स्वास्थ्यकेन्द्राणि चिकित्साकार्येष् निरतानि सन्ति चत्वारिंशत्सहस्राणां चिकित्सा परिसराणां निर्माणस्य लक्ष्यं अवाप्तुं प्रशासनं त्रयोदश सहस्राणि स्वास्थ्यकेन्द्राणि मार्चमासपर्यतं प्रतिष्ठापयिष्यते समुद्घोषणाम् मिंग स्वास्थ्यमन्त्री डॉ हर्षवर्धन प्रख्यापयत् असौ नवदिल्यां समायोजिते विश्व स्वास्थ्य सम्मेलने सम्भाषते स्म